भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्प स्वीक्वन्त् मुखावरकं सन्धारयन्त् सामाजिकदौर्यं परिपालयन्त् पाणिपादं च यथासमयं प्रक्षालयन्त लोकसभा स्थगनम लोकसभायां हयस्तनं कार्यजातं विपिक्षदलानां कृषि अधिनियमान् अभिलक्ष्य कृतकोलाहलकारणात् स्थगितम्

राज्यसभा राज्यसभायाम् ह्य राष्ट्रपते अभिभाषणस्य धन्यवाद प्रस्तावम् अवलम्ब्य चर्चा समारब्धा उत्तदर्थ प्रश्नकाल स्थगित चर्चा सहभागितां क्र्वन्ति विपक्षिदलानि कृषकाणां विरोध प्रदर्शनमालक्ष्य कृषि सम्बद्धानां विधेयकानां निरस्तीकरणं याचितवन्ति

विपक्षिदलस्य नेता ग्लाम नवी आजाद अवोचत् यत् कृषि विधेयकानि संसद स्थायि समितिं प्रति प्रैषयिष्यत् चेत् सुष्ठु समाधानं समागमिष्यत्

सममेव प्रधानमन्त्री डाक म्द्राम् अपि लोकेभ्य अर्पयिष्यति

ऐरो शो शियाया बृहत्तमा ऐरो इंडिया इत्याख्या प्रदर्शनी ह्य रक्षामन्त्रिणा राजनाथ सिंहेन समुद् घाटिता कार्यक्रमं सम्बोधयन् रक्षामन्त्री राजनाथ सिंह स्वदेशे निर्मितानां शस्त्राणां संवर्धमान आपूर्ते उल्लेखं व्यदधात् रक्षामन्त्रिणा सममेव देशे नागरिक उड्डयन क्षेत्रस्य विवर्धमानं अभियाचनं आलक्ष्य वित्सम्बद्धानि संस्थानानि विशेषज्ञा कार्यकर्त्तारश्च आमन्त्रितानि

सूचना प्रविधि मन्त्रालयान्सारि ट्वीटर मञ्चे नैके जना भारतविरोधि लेखान् लिखन्त सन्ति यद्धि जनेषु अस्थिरताम् आनेतुं देशविरोधिनां दृष्प्रचारयुक्त यत्न